उच्चतम न्यायालयेन देशे नागरिकता संशोधन विधे प्रवर्तनं सम्चितं प्रत्याख्यातम् एतत्प्रवर्तनावरोध निराकृत झारखण्डे विधानसभा निर्वाचनानां पञ्चमान्तिम चरणार्थ प्रचाराभियानस्य अदय अंतिमो दिसवो विदयते

या अद्य तदीया वार्षिकी प्रस्कासंस्थ अकादमी शीर्षन्यायातय शीर्षन्यायालयेन निर्भया सामूहिक द्ष्कृति हत्या प्रकरणे संलिप्तानां चत्र्णा दोषिणां मृत्य्दण्ड यथावस्थ सुरक्षित न्यायमूर्ते आर् भान्मति अध्यक्षता यूतेन न्यायाधीश त्रयाणां खण्डपीठेन द्वि वर्ष पूर्व श्रावितस्य स्वीय निर्णयस्य विरोधे पञ्जीकारिता पुनर्विचार याचिका निराकृता पुनर्विचार याचिकेयं दोषिणा अक्षय क्मार सिंहेन पञ्जीकारितमासीत् अत्रान्तरे दोषिण याचिकाया विरोधं क्र्वन् महाधिवक्ता तृषार मेहता न्यायालयं व्यज्ञापयद् यत् कथमपि अक्षय नास्ति दया याचक योग्य अमुनोक्तं प्रकरणे दोषिण विरूदधय मृत्युदण्डस्य प्रावधानं यथाशीघ्रम् अनुपालनीयम्

शीर्षन्यायालय उच्चतम न्यायालयेन देशे नागरिकता संशोधन विधे प्रवर्तनं समुचितं प्रत्याख्यातम एतत्प्रवर्तनावरोध निराकृत न्यायालयेन परं इमं विधिं विरूदधय संवैधानिक वैधता विषये समाहवयन्त्याम् याचिकायां केन्द्र प्रशासनं परिपृष्टमस्ति

ध्येयमस्ति यत् नागरिकता संशोधन विधे विरोधे इण्डियन यूनियन मूस्लिम लीग इत्यनेन कांग्रेसनेत्रा जयराम रमेश इत्यम्ना अन्यैश्च जनै याचिका पञ्जीकृतास्सन्ति प्रशासनम् बालै सार्ध द्ष्कृति सन्निभानाम् सर्वेषामपि प्रकरणानां यथाशीघ्रं समाधानम् उद्दिश्य प्रशासनं देशे सहस्राधिकानां फास्ट ट्रैक इति विशिष्ट न्यायालयानां प्रतिष्ठापनाय निर्णयो गृहीत सप्तषष्टि कोटि रूप्यकाणां व्ययपूर्वकं केन्द्र राज्य इति प्रशासनद्वयं सम्मिल्य कार्यमिदं सम्पादयिष्यते

भारतस्य त्रिंशदत्तर शतं नागरिकान् विधिरेष न कथमपि द्ष्प्रभावयिष्यति किञ्च अवैध प्रवासिनां कृते नूनं चिन्तावह विद्यते नागरिकता संशोधन विधि एष असौ अद्य नवदिल्याम् समायोजिते एकस्मिन् कार्यक्रमे सम्भाषते स्म अमुनोक्तं छात्राणां समस्या समाधानार्थ प्रशासनस्य दवारं सर्वदास्ति समृदघटितम् शान्तिरेवास्ति मात्रमेकं सर्वासां समस्यानां समाधानम्

दशमी कक्षाया परीक्षा आगामिनो फरवरी पञ्चदश दिनांकत आरभ्य मार्चमासस्य विंशति दिनांकं यावत् प्रवर्तिष्यते तथैव फरवरी पञ्चदश दिनांकत उच्चमाध्यमिक स्तरीया परीक्षा मार्चमासस्य त्रिंशद्दिनांकं यावत् अन्वर्तिष्यते

झारखण झारखण्डे विधानसभा निर्वाचनानां पञ्चमान्तिमचरणार्थ प्रचाराभियानस्य अदय अंतिमो दिसवो विदयते

घोषणान्सारि त्रयोविंशति भाषासू कृता अभूत पूर्व रचना आलक्ष्य प्रस्कारा इमे प्रदास्यन्ते अत्र प्रसंगे संस्कृतभाषायां पेन्ना मध्सूदनवर्य् प्रतिष्ठित प्रस्कारेणैतेन बहमानयिष्यते

इति वार्ता